कर्णाटकप्रशासनम् कर्णाटके नवप्रशासन संरचन विषये भाजपादलस्य राज्य एकांश संसदीय दलस्य निर्देशानां प्रतीक्षां करोति दलस्य विधायकः मध्स्वामी अद्य बंगलूरू नगरे वर्ताहरान् अवोचत् यत् संसदीय दलस्य निर्देशानन्तरं विधायक दलस्य उपवेशनं निर्धारयिष्यते

यतोऽहि एतद्वि शिमला सन्धे उल्लंघनं भविष्यति लोकसभायां शून्यकाले विदेशमंत्री एसजयशंकर पूर्वमेव स्पष्टं अकरोत् यत् गतमासे जापानदेशे प्रधानमन्त्रिणा नरेन्द्रमादिना अमेरीकीय राष्ट्रपतिना डानल्डट्रम्पेण सह विषयेऽस्मिन् चर्चा नैव कृताऽसीत् वित्त्मन्त्री आयकरदिवस वित्तमन्त्री निर्मला सीतारमण विगत पञचपर्षेष् करसंग्रहणस्य द्विग्णीकरणाय आयकर विभागं वर्धापितवती नवदिल्याम् अद्य आयकर दिवसावसरे तयोक्त यत् कर प्रवर्तनस्य सिद्धांत धनस्य सम्चितं समान च प्नर्वितरणं विद्यते विकासपथि अग्रसरं राष्ट्रं राजस्व प्राप्ते उपेक्षां नैव कर्त्रं शक्ष्यति वितमन्त्रिणा करक्षेत्रस्य विस्तार सबलं प्रतिपादित एतदर्थं सर्वेरपि विभागै सम्भूय कार्यं करणीयमिति अपि तया प्रोक्तम्